केन्द्रीय लौहसार विभागीयो मन्त्री धर्मेन्द्र प्रधानः गतदिवसे कोलकातायां पूर्वोदयाऽभियानं प्राव्धवान् ग्जरातस्य वडोदरा जनपद स्थे एकस्मिन ऑक्सिजन वाति प्रप्रकोद्योग परिसरे ह्यो दरापन्ने भीषण विस्फोटे अष्टौ श्रमिकाः मूताः तावन्त एव च क्षताः संजाताः सुच्यन्ते कृतज्ञ राष्ट्रम् अद्य स्वामि विवेकानन्दस्य एक पञ्चाशद्तर शत तर्मी जयन्ती सोल्लासं समायोजयति प्रधानमन्त्री कोलकाता प्रधानमन्त्री श्रीनरेन्द्र मोदी भारतं पारम्परिक स्थलानां प्रम्ख पर्यटन केन्द्रत्वेन प्रतिष्ठापयित्ं समाहतवान् गतदिने कोलकातायाम् ऐतिहासिके प्राचीनमुद्रा भवने प्रतिमाया अनावरणाऽनन्तरं श्रीमोदी तत्र स्वीयोद्रारं प्रकटयति स्म पश्चिम बंगाले कलानां संस्कृतेश्व समुद्ध परम्परायाः प्रशंसामाचरन् प्रधानमन्त्री प्रावोचत् यद देशः वर्षद्वयाऽनन्तरं स्वाधीनतायाः पञ्च सप्तति वर्ष पूर्त्यृत्सवेन सहर्द्वईश्वर चन्द्र विद्यासागरस्य द्विशत तमीं राजा राममोहन रायस्य सार्ध द्विशत तमीं च जयन्तीमपि सोल्लासं समायोजयिष्यति अत्रान्तरे अद्य स्वीय पश्चिम बंगाल यात्रायाः द्वितीये दिवसे प्रधानमन्त्री तत्र कोलकाता पोतागार न्यासस्य साधैंक शत वर्ष पूर्त्युत्सवं समुद्घाटयिष्यति अवसरेऽस्मिन् श्रीमोदिना नक्कीः नूतन परियोजनाः अपि समारप्स्यन्ते लौहसारः प्रधानः केन्द्रीय लौहसार विभागीयो मन्त्री धर्मेन्द्र प्रधानः गतदिवसे कोलकातायां पूर्वोदयाऽभियानं प्राब्धवान् अवसरेऽस्मिन् जनान् सम्बोधयन् श्रीप्रधानः प्रावोचत् यत् पूर्वीय क्षेत्राणि देशस्य प्रतिशतं पञ्च सप्तत्यंश परिमितां लौहसारावश्यकतां प्रपूरथितं सामथ्यं दधाति

अत्र राज्ये विगतेष् लोकसभा निर्वाचनेष् एषा क्षेत्राणा मतदातृभिः स्वीय मताधिकार प्रयोगे स्वल्पराऽभिरुचिः प्रदर्शिता आसीत् गजरातः विस्फोटः ग्जरातस्य वडोदरा जनपद स्थे एकस्मिन् ऑक्सिजन् वाति प्रप्रकोद्योग परिसरे ह्यो द्रापन्ने भीषण विस्फोटे अष्टौ श्रमिकाः मृताः तावन्त एव च क्षताः संजाताः सूच्यन्ते आरक्षि सूत्रानुसारि विस्फोटोऽयं तत्र सहसा अग्नि प्रदीपनाऽनन्तरं द्रापन्नः

भारतीय भूमेः महत्तमेष् धर्म गुरुष् अन्यतमः स्वामी विवेकानन्दः देशस्य योग वेदान्त सिद्धान्ता विश्व परिचायितवान्